राष्ट्रपति भवने अद्य प्रभृति राज्यपालानाम् उप राज्यपालानां च दिवस द्वयात्मकं सम्मेलनम् आरभते

विरेन्दर सिंह दुबई अन्तराष्ट्रिय वेदिकायां चार्ल्स एडामुं पराजित्य प्रवर्तनमानां मुष्टी मुष्टि स्पर्धा शृंखलां विजितवान्

गतदिवसे भावि प्रशासन संरचनाया पद्धतिम् अधिकृत्य दल त्रयस्य संयुक्ता मन्त्रणा गोष्ठी मुम्बय्यां प्रवृत्ता मन्त्रणाऽनन्तरं राष्ट्रवादि दलस्याध्यक्ष शरद पवार वार्ताहरान् व्याहरत् यत् महाराष्ट्रे नृतन प्रशासनं शिव सेना प्रमुख उद्धव ठाकरे एव संनयेत् वितद विषये समेषां पक्षाणां सांमत्यं विद्यते राज्यपाल सम्मेलनम् राष्ट्रपति भवने अद्य प्रभृति राज्यपालानाम् उप राज्यपालानां च दिवस द्वयात्मकं सम्मेलनम् आरभते राष्ट्रपतिना श्रीरामनाथ कोविन्देन सम्मेलनस्य आध्यक्ष्यं विधास्यते राष्ट्रपति भवने तदिदं पञ्चाशत्तमं सम्मेलनं भविष्यति अत्र निर्धारितेष् विभिन्न सत्रेष् प्रमुख विषयानुसारि चर्चा भविष्यन्ति जनजातीय समस्या कृषिक्षेत्रीय परिष्कारा जल जीवनाभियानम् उच्चशिक्षायै नृतन शिक्षानीति जीवन सौविध्योपकल्पनं च चर्चिष्यमाण विषयेष् अन्यतमा भविष्यन्ति अत्र सम्मेलने उपराष्ट्रपति एम् वेंकैया नायड् प्रधानमन्त्री नरेन्द्र मोदी कृषिमन्त्री नरेन्द्र सिंह तोमर विधि न्याय विभागीयो मन्त्री रविशंकर प्रसाद नैके चान्ये गणमान्या उपस्थिता भविष्यन्ति

आकाशवाणीतः प्रतिमासं प्रसार्यमाणस्य अस्य कार्यक्रमस्य अयम् ऊनषष्टितमः अङ्कः विद्यते अस्य प्रसारणम् आकाशवाणी दरदर्शनयोः सर्वाभिरपि वाहिनीभिः विधास्यते

चतुर् दिवसीय यात्रायां सम्प्राप्तस्य एतद् वृन्दस्य नेतृत्वं कर्पास विकास निदेशालयस्य निदेशकेन डॉआर्पीसिंहेन विधीयते

अधिकारिभि उक्तं यत् चन्दवा रक्षिस्थानान्तर्गतं लुकियाटांड ग्रामं निकषा आरक्षि निरीक्षणावसरे सायंकाले प्राय सार्धाष्ट वादने नक्सलवादिभि आरक्षिदलम् आलक्ष्य गोलिका वर्षणम् आरब्धम् मुख्यमन्त्रिणा रघ्वर दासेन आक्रमणमिदं विनिद्य वीराणां दिवंगतिम् अभिलक्ष्य गभीर शोक प्रकाशित मुष्टी मुष्टि ख्यातो भारतीयो मुष्टी मुष्टि स्पर्धी विरेन्दर सिंह दबई अन्तराष्ट्रिय वेदिकायां राष्ट्रमण्डलीय क्रीडास् वार द्रय विजेतारं चार्ल्स एडामुं महताऽन्तरालेन पराजित्य प्रवर्तनमानां मुष्टी मुष्टि स्पर्धा शृंखलां विजितवान् विरेन्दर शृंखलाया अष्टस्वपि चक्रेष् निरन्तरम् उत्कृष्टतरं प्रदर्शनं विहितवान्